प्रधानमन्त्रिणा रक्षा प्रदर्शन्या एकादश तमीयं संस्करणं समुद्घाट्य प्रोक्तं यत् भारतदेश रक्षा क्षेत्रे भद्र नीतिनां उपलब्धीनां च अमितोपयोग करोति जम्मू कश्मीरे सुरक्षाबलैस्सह सब्जाते संघर्षे आतंकिनौ मारितौ प्रधानमन्त्री केन्द्रीय मन्त्रिमण्डलेन अयोध्यायां राम मन्दिर निर्माणाय न्यासस्य विरचनाय निर्णयो विहित लोकसभायामद्य इदं संसूचयन् श्री मोदी प्रोक्तवान् यत् एतदर्थं सप्तषष्टि एकड़ भूमि न्यासाय हस्तांतरिता भविता प्रधानमन्त्रिणा प्रोक्तं यत् अयोध्या प्रकरणे उच्चतम न्यायालयस्य निर्देशे उत्तर प्रदेश प्रशासनं सुन्नी वक्फ मण्डलाय पञ्च एकड़ भूमे प्रदानार्थं सहमतं जातम् प्रधानमन्त्रिणा भणितं यत् भारतस्य जना लोकतान्त्रिक प्रणालिस् प्रक्रियास् च उल्लेखनीय विश्वास प्रकटयन्ति तेनोदीरितं यत् हिन्दुस्ताने प्रत्येकस्य पंथस्य जना हिन्दु मुस्लिम सिक्ख ईसाई वा पारसी जैन अवलम्बिन वा सर्वे एकस्थैव बृहद् परिवारस्य सदस्या सन्ति केन्द्रीय गृहमन्त्रिणा अमित शाहेनापि श्री राम जन्म भूमि तीर्थ न्यास निर्माणस्य प्रधानमन्त्रिणे शुभाशया प्रदत्ता उच्चतम न्यायालयस्य निर्णये प्रशासेन श्री राम जन्मभूमि तीर्थ क्षेत्र न्यास निर्माणस्य घोषणा विहिता न्यासेऽस्मिन् पञ्चदश सदस्या भविष्यन्ति मन्दिर सम्बद्ध सर्वेष् निर्णयेष् न्यासमिदं पूर्णतया स्वतन्त्र भविष्यति रक्षा प्रदर्शनी प्रधानमन्त्रिणा नरेन्द्रमोदिना अद्य भणितं यत् भारतदेश रक्षा संरचना क्षेत्रे सकारात्मक नीतिनां निर्माणे च तदीय प्रशासनं व्यापार क्षेत्रे उपलब्ध्यर्थं सर्वमेव विदधाति असौ अद्य लखनऊ नगरे प्रर्वतमानवर्षीय एकादश तमीय रक्षा मन्त्रालयस्य द्विवार्षिक आयोजनस्य रक्षा प्रदर्शन्या श्भारम्भानन्तरं ब्रवीति स्म अवसरेऽस्मिन् तेन गृद्धीय रक्षोत्पादे गत पञ्च वर्षेष् अर्थपूर्ण प्नारचना विषये सबलं प्रतिपादितम् प्रोक्तञ्च यत् देशे अध्ना निवेशाय नवाचाराय च सम्चित वातावरणं विद्यते तेनोक्तं यत् रक्षा सेना प्रविधि दृष्प्रयोगे आतंकवाद सम्बद्ध समस्या सम्मुखी करोति तेन भणितं यत् रक्षा प्रदर्शनी जगति बृहत्तमा प्रदर्शनी विद्यते मन्त्रिमण्डलम् मन्त्रिमण्डलेन सहकारी बैंकानि भारतीय रिजर्व बैंकस्य नियामक नियन्त्रणान्तर्गतम् आनेत् निर्णयो विहित मन्त्रिमण्डलस्य सम्मेलन विषये सूचयता सूचना प्रसारण मन्त्रिणा प्रकाश जावडेकरणाद्य नवदिल्ल्यां भणितं यत् निर्णयात् अस्मात् सहकारी बैंकानां कार्यजाते अधिकम् उत्तर दायित्वं पारदर्शिता च समागमिष्यति सूचना प्रसारण मन्त्रिणा सूचितं यत् मन्त्रिमण्डलेन सूचना प्रविधि सम्बद्ध संस्थानानां संशोधन विधेयका अपि अनुमोदिता तेन भणितं यत् मन्त्रिमण्डलेन दहानू पार्श्वे वधावन क्षेत्रे जलपोत स्थापनाया प्रस्ताव अपि स्वीकृत

रविवासरात् आहत्य अष्टनेतार विमोचिता

एकश्च निगृहीत गोलिकास् केन्द्रीय आरक्षितारक्षिबलस्य वीर हतात्मभूतो जात

एतदर्थं तेन उच्च स्तरीयोपवेशनमपि विहितम् स्वास्थ्य मन्त्रालयेन प्रतिपादितं यत् जना जागरूका जाता